प्रधानमन्त्री उद्योगजगत चतुश्शताधिक नेतृणाम् उपस्थितौ चतुर्थ औद्योगिकक्रान्ति मानवता साहाध्याय प्रौद्यौगिक्या उपयोग इत्यस्मिन् विषये स्वीयं वक्तव्यं प्रदास्यते प्रधानमन्त्री कार्यक्रमस्य मुख्यकार्यकार्याधिकारिभि साकं अपि संवादम् आचरिष्यते ध्येयम् अस्ति यत् कोरोना इति वैश्विकसंक्रमणानन्तरं विश्व आर्थिक मञ्च इत्येतत् अन्तर्गतं अयं संवाद समायोज्यते इति इण्डिया आईई भारतेन वैश्विकोर्जास्रक्षा विवर्धयित् अन्ताराष्ट्रिय ऊर्जाभिकरणस्य सदस्यै साकं कार्यनीतिक सहभागितातन्त्र हस्ताक्षरै प्रमाणितम् सहभागितारिये परस्पर् सहयोग विश्वासं च संवर्धयित् वैश्विकोर्जासरक्षा स्थिरता च विवर्धयित् सम्पन्नताङ्गता अस्ति अनेन सहभागिता पदक्षेपेण ज्ञानस्य व्यापकरूपेण आदान प्रदानं भविता अन्ताराष्ट्रिय ऊर्जाभिकरणस्य पूर्णसदस्यदिशि भारतस्य अयं पदक्षेप महत्वपूर्णो मन्यते इद संस्कृतवार्ता प्रसारणम् आकाशवाणीतः प्रसार्यते

वित्त अन्दान वित्तमन्त्रालयेन अष्टादशराज्याणां ग्रामीण स्थानीयनिकायेभ्यो द्वादशसहम्रकोटि रूप्यकतोप्यधिकराशि प्रख्यापित अयं राशि अस्य वित्तवर्षस्य प्रख्यापितमुलानुदानेष् द्वितीयो मासदेयो वर्तते प्रथममासदेयस्य प्रमाणपत्र प्राप्ते सति अपि च पञ्चायती राज मन्त्रालयस्य अनुशंसाधारेण अयं मासदेय प्रकाशितोऽस्ति सामुदायिक परिसम्पत्तीनां सर्जनाय ग्रामीणस्थानीयनिकायाना वित्तीयवहनतायां परिष्काराय च पञ्चदश वित्तायोगस्य अन्शंसारूपेण अयं अनुदानराशि प्रकाशित साम्प्रतं यावत् ग्रामीण स्थानीयनिकायेभ्य आहत्य अष्टात्रिशदधिक सप्तशतोत्तर पञ्चचत्वारिशत् सहम्र कोटि रूप्यकाणां अनुदानं प्रख्यापितम् अस्ति इण्डिया श्रीलंका वैक्सीन भारत श्रीलंका देशयो परस्परसम्बन्धा अद्य अतोऽपि प्रगाढतां यान्ति यदा कोविड संक्रमणं पराङ्वखीकत्त् भारतस्य सूच्यौषध मैत्री इत्यस्य अन्तर्गत भारत अद्य श्रीलंकादेशाय सीरम इन्स्टीट्यूट इत्यत्र विनिर्मितानि पञ्चलक्ष कोविशील्ड इत्याख्यं कोरोना संक्रमणं प्रतिरोधी सूच्यौषधानि सम्प्रेषयिष्यते अवधेयं अस्ति यत् भारतं स्वीय सूच्यौषध मैत्री इत्येतदन्तर्गतं क्षेत्रीयेभ्य सप्तराज्येभ्य कोरोना संक्रमण प्रतिरोधी सूच्यौषधं प्रेषयति इति